प्रतिरक्षा संभार संकलन परिषदा भारतीय रक्षा बलेभ्य आयुध सामप्रीणां स्वदेशे प्रकल्पनाय विकासाय च त्रिशतोत्तर त्रिसहस्र कोटि रूप्यकाणि समन् मोदितानि ग्वाहाट्याम् अद्य प्रभृति समायोज्यमाने भारत बांग्लादेश सहभागि संमेलने व्यापार सम्पर्कों मुख्य विचार्य विषयौ भविष्यत रांच्याम् अन् वर्तमानायाम् आईसीसी विश्व क्रिकेट् निकष स्पर्धा मालिकायां निर्णायक द्वन्द्वे दक्षिणाफ्रीकां विरुध्य क्रीडत् भारतीयदलं सम्प्रति विजयोन्मुखं दरीदृश्यते

सहर्द्व सतारा समस्तीपुर लोकसभासनयो सप्तदशानां राज्यानाम् एक पञ्चाशद् विधानसभासनानां च कृते मतदानान्यपि ह्य एव समायोजितानि प्राप्त विज्ञप्तेरनुसार महाराष्ट्रे प्रतिशतं षष्ट्यधिक्ट हरियाणायां च प्रतिशतम् अष्ट षष्टि प्राय चितदातृभि स्वीय मताधिकार प्रयुक्त निर्वाचनोपायुक्त सन्दीप सक्सेना नवदिल्ल्यां वार्ताहरान् व्याहरत् यत् मतदानानां प्रतिशततेयं सम्प्रति भूयोऽपि वर्धित्महंति अत्रान्तरे परह्यो गुरुवासरे मतगणनार्थं सम्प्रति सज्जा प्रवर्तन्ते हिमाचल उपनिर्वाचनम् हिमाचल प्रदेशे द्वयो विधानसभासनयो कृते आहत्य प्रतिशतम् एकोनसप्तति मितं मतदानम् आकलितम् मुख्य निर्वाचनाधिकारी देवेश कुमार अवादीत् यत् धर्मशालायां प्राय प्रतिशतं पञ्चषष्टि दशमलव त्रि अष्ट मितं पछाड़ विधानसभा निर्वाचनक्षेत्रे च प्रायश प्रतिशतं द्विसप्तति दशमलवाष्ट पञ्च मितं मतदानम् अभिलिखितम् श्रीमता क्मारेण निगदितं यत् उभयत्रापि न काचिद् अवाञ्छिता घटना सूच्यते

मेक ति तिंडया त्विभियानस्यान्तर्गतम् अनया परिषदा भारतीयोद्योग समवायााएव निर्मेयाणाम् आयुध सामग्रीणां कृते परियोजना त्रयं प्रवर्तितमस्ति

प्रतिनिधि मण्डलमेतत् मञ्चाध्यक्षेण जॉन् चेम्बर्सेन सन्नीतमस्ति प्रधानमन्त्रिणा प्रतिनिधि मण्डलाय भारतीयार्थ व्यवस्थायां विश्वासार्थं धन्यवादो ज्ञापित

तेन सरलोद्योगं सरलजीवनञ्च पुरस्कृत्य सविस्तरं चर्चितम् प्रधानमन्त्रिण कार्य योजनायां विश्वासं प्रकटयता अमेरिकीय मव्चेनोदीरितं यत् भारतस्य आगामि पव्चवर्षाणि विश्वस्य पञ्चविंशति वर्षाणां भविष्यं निर्धारयिष्यन्ति